कौशल विकासोदयमिता मन्त्रालय दवारा देशस्य षड्शतं जनपदे समारप्स्यमाणे अस्मिन् तृतीयचरणे नवय्गः कोविड संबंद्ध कौशलञ्च इत्येतयोः विषययोः सबलम् अवधानं दीयते प्रधानमन्त्री कौशल विकासयोजनायाः अस्मै तृतीय चरणाय एतदार्थिकवर्षाय नव शून्य दशमलवोत्तर अष्टचत्वादिंशधिक नव कोटिरूप्पकाणि व्ययीक्रियन्ते यैः लक्षशः प्रशिक्ष्णां प्रशिक्षणं परिकल्प्यते नवविइत्यधिक सप्तशतं प्रधानमन्त्री कौशल केन्द्राणि एतद्योजनेतर प्रशिक्षण केन्द्राणि कौशलभारतन्तर्गतं द्विशत सख्याकानि भारतीय प्रौद्यगिकसंस्थान केन्द्राणि सम्भूय स्दृढं सेत् निमान्ति

केन्द्रीय वाणिज्योदयोग मन्त्रालय दवारा समायोज्यमाणे अस्मिन् प्रारम्भ उद्यम भारतान्ताराष्ट्रियं शिखर सम्मेलनम् इत्याख्ये समारोहे श्वः प्रधानमन्त्रिणो मोदिनः सम्बोधनं भविता केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अद्य शिखर सम्मेलनमिदं सम्दघाटयिष्यते अवधेयं तथ्यमिदं यत् शिखर सम्मेलनमिदं प्रधानमन्त्रिणो नरेन्द्रमोदिनो बिम्सटेक इत्याख्ये बह उददेश्यीय प्रौदयोगिकार्थिक सम्मेलनस्य प्नःस्मारणपुर्वकं विदयते

सूच्यौषध प्रयोगाभियानमिदं अशेषे हि देशे समायोक्ष्यते